एतदर्थं निवेद्यते यत् असावधानतां मा व्यवहरन्त्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

प्रधानमन्त्री समीक्षापवध्यिम् अद्य प्रधानमन्त्री नरेन्द्र मोदी देशे कोविड ऊनविंशति इत्यस्याः महामार्याः प्रचलितां स्थितिम् आलक्ष्य एकम् उच्चस्तरीयं समीक्षोपवेशनं करिष्यति अनेनैव कारणेन तेन अद्य पश्चिम बंगालं प्रति गमनमपि निरस्तीकृतम् अद्य प्रातः उच्चस्तरीय समीक्षोपवेशनस्य अनन्तरं प्रधानमन्त्री कोविड संक्रमणात् अतिमात्रेण संक्रमितानां राज्यनां मुख्यमन्त्रिभिः साकं संवादं करिष्यति तदनन्तरम् अपराहे सः देशस्य शीर्ष आक्सीजन निर्मातृभिः साकं दृश्य श्रव्य माध्यमेन उपवेशनं करिष्यति

अस्मिन् सम्बन्धे केन्द्रीय स्वास्थ्य सचिवेन अजय कुमार भल्ला इत्यमुना राज्यानां केन्द्रशासितप्रदेशानां सचिवान् लिखिते एकस्मिन् पत्रे लिखितं यत् करिन्नापि क्षेत्रे प्राणवायोः आपूर्तिकरणे बलप्रयोगमपि न कर्यात् अवधेयास्पदम् अस्ति यत् देशे प्राणवायोः आपूर्ति सम्यक् रूपेण स्निश्चीकरणाय एव पूर्वम् एव गतदिनात् प्राणवायोः औद्योगिक प्रयोगार्थम् आपूर्तिः निषिद्धीकृता आसीत्

रेलमन्त्री पीयूष गोयलः प्रोक्तवान् यत् रेलसेवामाध्यमेन अस्यां विषम परिस्थितौ अपि आवश्यक वस्तूनाम् आपूर्तिः अनवरत करिष्यते येन जनकल्याणं स्निश्चीभूयात् तत्रैव उत्तस्प्रदेशस्य चिकित्सकीय प्राणवायोः आपूर्ति कर्तुम् अपर द्रतगामि रेलयानम् लखनऊनगरात् वाराणसीं प्रति प्रस्थितम्

तेन प्रोक्तं यत् भारतेन स्वच्छ ऊर्जायाः ऊर्जा दक्षतायाः वृक्षारोपणस्य जैवविविधतायाश्व क्षेत्रे नैका पदक्षेपाः समृत्थापिताः

आयोगानुसारेण त्रिचत्वारिशत् विधानसभा निर्वाचन क्षेत्राणां अशीत्यधिक चतृश्शोत्तर चतुर्दश सहस्व मतदानकेन्द्रेष् अखिलं मतदानं शान्तिरूपेण जातमं सममेव मतदातृभिः कोविड संक्रमणंम अपाकत् स्वच्छतायाः सामाजिक द्रतायाः च समेत्य सर्वे रक्षोपायाः परिपालिताः